वृष्ट्याधिक्येन दृष्प्रभावितानां कृषकाणां साहाय्यार्थं महाराष्ट्र प्रशासनेन दश सहस्र कोटि रूप्यकाणि प्रदानाय अनुमोदितम्

प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अद्य बैंकॉकनगरे षोडशे भारत आसियान शिखरसम्मेलने सहाध्यक्षं करिष्यति श्रीमोदी भारत आसियानदेशानां मध्ये परस्पर संबंधानां विषये चर्चां करिष्यति अनन्तरं थाइलैंडदेशस्य प्रधानमन्त्रिणा इण्डोनेशियाया राष्ट्रपतिना म्यामारस्य प्रतिनिधिना च साकं श्रीमोदी द्विपक्षीयं सम्भाषणं आर्चरिष्यति श्रीमोदी आदित्य बिडला समवायस्य जयन्त्यवसरे आयोजयिष्यमाणे कार्यक्रमे अपि उपस्थास्यति अस्माकं वार्ताहरेण प्रोक्तं यत् आसियान राष्ट्रै सह भारतस्य संबंधा विदेशनीतौ स्तम्भस्वरूपेण कार्यमाचरिष्यन्ति इति राष्ट्रपति राष्ट्रपति रामनाथकोविंद सिक्किमस्य द्वि दिवसीयायां यात्रायाम् लिंगडम् मठं सम्प्राप्त श्रीकोविंद अद्य सिक्किम विश्वविद्यालयस्य दीक्षांतसमारोहे उपस्थास्यति उपराष्ट्रपति उपराष्ट्रपति एम् वेंकैया नायडू साम्प्रतिके काले प्राचीनां जीवनशैलीं अनुसरित् यून सविशेष न्यगादीत् या हि खल् अस्मदीयै ग्रूजनै साध्भिश्च सम्प्रेरिता आसीत् उपराष्ट्रपति गतदिने कर्नाटक नगरे मैसूरूस्थे जे एस् एस् इति उच्चशिक्षानुसन्धान संस्थाने समायोजिते दीक्षान्त समारोहे सम्भाषते स्म महाराष्ट्रम् वृष्ट्याधिक्येन दृष्प्रभावितानां कृषकाणां साहाय्यार्थं महाराष्ट्र प्रशासनेन दश सहस्न कोटि रूप्यकाणि प्रदानाय अन्मोदितम् शस्यानां क्षतिमाधृत्य मुम्बव्यां समाचरिते केन्द्रीयोपसमिति संबादे महाराष्ट्रीयो मुख्यमन्त्री देवेन्द्र फडणवीस कृषकेभ्य एतत् साहाव्य राशि प्रदानं निर्णीतवान् छठपर्व देशस्य विभिन्न भागेष् धार्मिक हर्षोल्लासेन समायोज्यमनाया चतुर्दिवस व्यापिन्या छठ विशेष प्जाया अद्यावसानदिनं वर्तते श्रद्धालव नदीष् तडागेष् सरोवरेष् उदीयमानाय सूर्याय अर्घ्यप्रदानानन्तरं षट् त्रिंशत् होरात्मकम् उपवासम् समाप्य परस्परं प्रसाद वितरणं करिष्यन्ति ग्रहीष्यन्ति चापि